प्रधानमंत्री नरेंद्र मोदी न्यगादीत् यत् प्रशासनं लघुनगराणां आत्मनिर्भर भारतस्य क्वित्वर्तविनिर्माण बलं यच्छति असौ अद्य आगरानगर चिंट्रोपरियोजनाया निर्माणकार्यस्य शुमारम्भ व्यदधात्

कोरोनात राष्ट्रिया स्वस्थता मिति अपचीय चतुर्णवति दशमलव चतु पंच परिमिता समंकिता

अमुनोक्तं विपक्षिदलानाम् एतादृक् आचरणं द्योतयति यत् तानि स्वीयास्तित्व रक्षणाय प्रयतमानानि सन्ति

युगपदक्षी अमना विपक्षिदलानि विनिन्दितानि प्रोक्त यत् मात्र राजनीतिकं लाभम् उद्दिश्य विपक्षिदलानि प्रवर्तमानं कृषि आन्दोलनं समर्थयन्ति

एतदवधर्मीयत् शनिवासरक्रिषिमन्त्रिणा सह समाचरित िचमस्तरीय वितर्तावधौ कृषका आश्वासिता आसन् यत् न्यूनतम समर्थन मूल्यं यथावद्व प्रवर्तयिष्यत ऐतदवसानस्य नास्ति कथमपि आशंका

आगराया मैट्रोपरियोजना अस्थैव संकल्पस्य एकं उदाहरणमस्ति प्रधानमंत्री अद्य आगरानगर मैट्रोपरियोजनाया निर्माणकार्यस्य शुमारम्भ व्यदधात् अत्रावसरा क्रेंद्रीय आवासनागरमन्त्री हरदीप सिंह पुरी उत्तर प्रदर्शिय मुख्यमंत्री योगी आदित्यनाथ उपस्थितौ आस्ताम् अत्र कार्यक्रम अन्तर्जालमाध्यमर सहभागिता कुर्वन् प्रधानमंत्री प्रावोचत् यत् प्रत्यक्क्मपि दप्रव्रासी कोरोना महामार्या रोधक सुच्यौषधं प्रतीक्षत जास्त्यक्ति प्रतीक्षा इदानी दीर्घकालिकी अमुना विषाणु सम्बद्धानां दिशानिर्देशानाम् काठोर्येण अनुपालनाय जना परामृष्टा

श्रीमता मोदिनोक्त यत् इत प्राक् यात्रा पर्यटनयो प्रतिस्पर्धात्मक सुचकांक दृष्ट पंचषष्टितमस्थिान अवर्तत इदानीं चतुर्विंशतितम थान विद्यत उत्तर प्रदृष्ट मद्री रत्त्र निगम आगरामैट्रोपरियोजनाया वीथिद्वयस्य निर्माणाय पंचवर्षीया सीमा निर्धारिता अस्ति परियोजनर्दी नगरस्य सर्वाण्यपि प्रम्खपर्यटनस्थलानि योजयिष्यति सार्धनवविशतिकिलोमीटर मितर्द्व परियोजना प्राय चतुरशीतिअर्बुदरूप्यकाणो व्ययप्त निर्मास्यति

षष्टिलक्षमिताः पर्यटकाश्वापि परियोजनया लाभान्विता भवितार अत्रावसरउत्तर प्रदर्शास्य मुख्यमंत्री योगी आदित्यनाथ न्यगादीत् यत् आगरा मंट्री परियोजनया राज्यस्य आधारभूतसंरचना द्रढा भविता युगपद्वकेंद्रीय नागर विकास मंत्री हरदीप सिंह पूरी प्रावोचत् यत् राज्यत्तिदीयविभागस्था सकला अपि परियोजना तीव्रगत्या प्रवर्तन्त स्शील मोदी अद्य भारतीय जनता पार्टी इति दलस्य वरिष्ठनत्ति अपि च बिहार राजस्य पूर्व उपमुख्यमन्त्री स्शीलमोदी सर्वसम्मत्या राज्यसभाया सदस्यत्व चितो जात एतत्सम्बद्धं प्रमाणपत्रं पटना संभागस्य राज्यसभा मताधिकारी संजय अग्रवाल इत्याख्यप्त अस्मै प्रदत्तम् इदमालक्ष्य बिहार राज्यस्य मुख्यमन्त्रिणा उपमुख्यमन्त्रिणा च वर्धापितम्

निगडनमिदं आतंकवादिभिस्सह संजात संघर्षावधौ प्रवर्तिततम्

साम्प्रतं षण्नवति सहम्रोत्तर त्रि लक्ष संख्याका जना सन्ति संक्रमणग्रस्ता राष्ट्रिया स्वस्थता मितिश्चापि अपचीय चतुर्णवति दशमलव चतु पंच परिमिता समंमिता

विगत अहोरात्र ज्ञायणी नव शताधिक द्वात्रिंशत् सहम्रादपि अधिकं महामार्या नवप्रकरणानि पृष्टिंगतानि तत्रैव प्राय चत्वारिशत्सहसं सक्रमिता स्वास्थ्यलाभम् अवाप्य गृहं प्रत्यवर्तिता

एवं प्रारूप परीक्षणस्य कुल संख्या आहत्य सप्ताशीति सहम्रोत्तर सप्तसप्तति लक्षधिक चतुर्दश कोटितोपि अधिका संकृत्ता

संस्थानस्य मुख्य कार्य कार्यधिकारी अदार पूनावाला प्रावोचत् यत् सूच्यौषधमिद महत्संख्यायां जनजीवनं रक्षिप्यति भारतस्य औषधि महानियन्त्रकाय प्रश्तितमिजावत्ति ज्ञिंस्थानतकथितमस्ति यत् महामार्या वर्तमान स्थितिं अवधार्य सूच्यौषधप्रयोगस्य आपादनुमति अस्ति महदावश्यकी

अत्र चरण चित्रत्रिंशत् जनपद विकास निर्वाचनक्षक्क्रि मतदानानि विहितानि आरम्भिक चर्तुहोरास् प्राय सप्तविंशति प्रतिशतं यावत् मतदानं संमंकितम् अस्माकं वार्ताहरण्ञ सूचितं यत् जम्मूनगरस्य सप्तदश संभागष्ट्री सप्तत्रिशत् दशमलव अष्ट अष्ट प्रतिशतानि अथ कश्मीरस्यापि सप्तदश सम्भागप्रीचतुर्दश दशमलव अष्ट सप्त प्रतिशन्मितानि मतदानानि संजातानि